अयं हि राष्ट्रिय पोषणमास रूपेण परिपाल्यते

स्विस बैंक भारत स्विट्ज़रलैण्ड देशयो मध्ये विहित सन्धे अनुसारं स्विट्ज़रलैण्ड देशस्य बैंकेष् भारतीय नागरिकाणां लेखाविवरणम् अद्यारभ्य कर विभागस्य अधिकारिभ्यो उपलप्स्यते केन्द्रीय प्रत्यक्ष कर बोर्ड इत्यनेन प्रोक्तं यत् अवैध धनं विरुध्य प्रशासनस्य संघर्षे अयं महत्वपूर्ण पदक्षेपो भविष्यति अनेन स्विस बैंके ग्रप्त लेखानां गोपनीयता समाप्तिं यास्यति देशदवयस्य मध्ये वित्तीय लेखानां आदान प्रदानस्य अन्तर्गतम् अदयारभ्य सुचना प्राप्स्यन्ते जावडेकर सूचनाप्रसारणमंत्री प्रकाश जावड़ेकर गतदिने केन्द्रीय फिल्म प्रमाणन बोर्ड इत्यस्य नुतनं प्रतीक चिह्नस्य प्रमाणपत्राणां च विमोचनं अकरोत् विमोचनसमारोह म्म्बय्यां समायोजित

श्रीनायड्रना भारतीय रेलविभागस्य कीर्तिमानं स्रंगमिदं प्रोक्तम् अम्ना नियतकाले निर्माणाय रेलविभागस्य प्रशंसा कृता

द्वाविंशति वर्षीया यशस्विनी निर्णायकचक्रे षड्रत्रिंशदाधिक द्विशतं अंकान् प्राप्य स्वर्णपदकम् विजितवती क्रिकेट भारत वेस्टइण्डीज़ दलयो द्वितीय क्रिकेट निकष स्पर्धाया द्वितीये दिने वेस्टइण्डीजदलेन सप्तक्रीडकानां हानौ सप्ताशीति धावनांका समर्जिता इतः प्राक् भारतेन प्रथमपर्याये षोडशोत्तर चत् शतं धावनांका समधिगता